राष्ट्रपतिना उपराष्ट्रपतिना प्रधानमन्त्रिणा रक्षामन्त्रिणा गृहमन्त्रिणा अन्य नेतृभिश्च तस्याः निधनम् अन्शोचितम् जम्मू कश्मीर पुनर्घटन विधेयकं संसदा अभ्युपगतम् प्रधानमन्त्रिणा विधेयकमिद स्मरणीयावसरत्वेन प्रतिपादितम् लोकसभा अनिश्चितावधये स्थगिता लोकसभाध्यक्षेण सत्रमिदम् एतिहासिकं वर्णितम् ग्यानाया विंशतिः प्रति विंशति अन्ताराष्ट्रिय क्रिकेट् स्पर्धायां भारतेन वेस्टइण्डीजदलं सप्तक्रीडकाणां सुरक्षापूर्वकं पराजितम् सुषमास्वराज निधनम् प्राक्तन विदेशमन्त्री सुषमास्वराजः गतरात्रौ नवदिल्ल्यां हृदयाघातकारणात् दिवंगता असौ सप्तष्टि वर्षीया अवर्तत अखिल भारतीयायुर्विज्ञानसंस्थानस्य स्रोतोभिः सूचितं यत् वरिष्ट भाजपा नेत्री रात्रौ सार्धनववादनस्य दश वादनस्य च मध्ये अखिलभारतीययूर्विज्ञानसंस्थाने उपचारार्थ प्रवेशिता अध च प्रथमम् आपत्कालिक चिकित्साकक्षे नीता

श्रीमतीस्वराजस्य चिकित्सालये प्रवेशानन्तर स्वास्थ्य मन्त्रिणं हर्षवर्धनं समेत्य कतिपयाः वरिष्ठाः मन्त्रिणः अखिलभारतीयाय्विज्ञानसंस्थानं सम्प्राप्ताः षोडशोत्तर द्विसहस्रतमे वर्षे सुषमास्वराजस्य वृक्क प्रत्यारोपणं जातमासीत् अध च स्वास्थ्यकारणात् लोकसभा निर्वाचनेष् नैव स्पर्धित् तया निर्णीतमासीत् राष्ट्रपतिना रामनाथ कोविन्देन उपराष्ट्रपतिना एम वेंकैया नायड्ना प्रधानमन्त्रिणा नरेन्द्रमोदिना रक्षामन्त्रिणा राजनाथ सिंहेन भाजपाध्यक्षेण गृहमन्त्रिणा च अमितशाहेन अथ च कतिपयैः नेतृभिः सुषमा स्वराजस्य निधनम् अन्शोचितम् वार्ताहैरैः सह सम्भाषमाणेन भाजपा दलस्य कार्यकार्याध्यक्षेण जे पी नड्डा वर्येण प्रोक्त यत् श्रीमतीस्वराजस्य पार्थिवशरीर जनाना सम्मान प्रदानाय तस्याः आवासे स्थापयिष्यते तेनोदीरितं यत् अद्य एकादश वादने श्रीमतीस्वराजस्य पार्थिवावशेषः अन्तिमदर्शनार्थं भाजपा मुख्यालये स्थापयिष्यते अद्यापराहणे त्रिवादने लोदी रोड स्थिते शवदाह गृहे पूर्णराजकीय सम्मानपुरस्सरं तस्याः अन्त्येष्टिः विधास्यते

स्वीय ट्विट् सन्देशेष प्रधानमन्त्रिणा भारतीय संसदीय लोकतन्त्रे स्मरणीयावसरत्वेन प्रतिपादितम् तेन समाश्वासितं यत् सम्भ्य राष्ट्रम् उन्नतिपथे अग्रेसरिष्यति अध च त्रिशताधिकैकशतकोटि भारतीयानां स्वप्नं प्रपूर्विष्यति

लोकसभाध्यक्षेण सत्रमिदम् ऐतिहासिकं वर्णितम् जम्मू कश्मीर सम्बद्धस्य विधेयकस्य अनुमोदनानन्तर लोकसभाध्यक्षेण ओम बिडला वर्येण विषयेडस्मिन् उद्घोषितम् पाकिस्तान विस्फोट गतदिने पाकिस्तानस्य बलुचिस्तान प्रान्ते द्रापादितेन विस्फोटेन एको जनः मृतः अन्ये कतिपयाश्च आहताः सब्जाताः आरक्ष्य्पमहानिरीक्षकेण सब्जार माध्यमानि सूचितानि यत् सर्वे आहताः उपचाराथं चिकित्सालये प्रवेशिताः सन्ति क्रिकेट् गुयानायां सम्पन्नायाम् विंशतिः प्रति विंशति इति अन्ताराष्ट्रिय स्पर्धायां भारतेन वेस्टइण्डीजदलं सप्त क्रीडकाणां सुरक्षापूर्वकं पराजितम्